अपित् अनेन अस्माक ं मनोबल ं संवर्धितम् तेन राष्ट्रनिर्माणे वैज्ञानिकानां परिश्रम श्लाघित कनाडाया बियांका एन्ड्रीस्क्यू सेरेना विलियम्सं पराजित्य अमरीकी मुक्त महिला एकल अन्तिमस्पर्धां विजिता इसरो इसरो इति भारतीय अन्तरिक्ष अनुसंधान संघटनेन प्रोक्तं यत् सम्पर्क विच्छेदं विहिते सति चन्द्रयानद्वितीयस्य प्रतिशतं पञ्चनवतिमितं कार्य पूर्ण जातम् अपि चोक्तं यत् इद अभियानं पूर्वापेक्षया प्रौद्योगिकदृष्ट्या महत्त्वपूर्ण विद्यते अस्मिन् चन्द्रमस दक्षिण ध्र्वे नवीनस्थानस्य अन्वेषणे प्रौद्योगिकोपकरणं प्रयुक्तमस्ति प्रधानमंत्री प्रधानमंत्री नरेन्द्रमोदी प्रावोचत् यत् चन्द्रयानद्वितीयस्य प्रक्षेपकस्य पृथिव्या सह सम्पर्क विच्छेदेन वयं नैराश्यं नैव गता अपितु अनेन अस्माकं मनोबलं संवर्धितम् तेन राष्ट्रनिर्माणे वैज्ञानिकानां परिश्रम श्लाघित इसरो इत्यस्य नियन्त्रणकेन्द्रेण निज विज्ञप्तौ प्रोक्तं यत् सम्पर्क विच्छेदस्य कारणानि ज्ञास्यन्ते इसरो अध्यक्ष इसरो इति भारतीयान्तरिक्षानुसंधानसंघटनस्य अध्यक्ष डॉ शिवन प्रावोचत् यत् प्रधानमन्त्रिण नरेन्द्रमोदिन अन्तरिक्षकेन्द्रे प्रदत्तं भाषणं वैज्ञानिकेभ्य प्रेरणास्रोत वर्तते प्रसारभारत्या सह साक्षात्कारे अमुनोक्तं यत् श्रीमोदिन सम्बोधनम् अस्मान् प्रेरयिष्यति

औरंगाबादे एकस्मिन् समारोहे प्रधानमंत्री प्रावोचत् यत् वीथि देशे औद्योगिक गतिविधीनां केन्द्रं भविष्यति प्रधानमन्त्रिणा नरेन्द्रमोदिना गतदिने मुम्बय्यां भारत अर्थ मूवर्स इति समवायेन निर्मितस्य प्रथम मैट्रो कोच् इत्यस्य उद्घाटनं कृतम् श्रीमोदिना अंधेर दहिसर मैट्रो पथे वांगडुंगरी मैट्रो स्थानकम् अपि उद्घाटितम् सममेव नवदश सहस्र कोटि रूप्यकाणां मैट्रो कोरिडोर इत्यस्य आधारशिला अपि स्थापिता

अमरीकी ओपन कनाडाया बियांका एन्ड्रीस्क्यू सेरेना विलियम्सं पराजित्य अमरीकी मुक्त महिला एकल अन्तिमस्पर्धां विजिता नवदश वर्षीया बियांका कोई ग्रैंड स्लैम प्रथमवारं प्रतियोगितां विजिता क्रिकेट् भारतेन वयसा ऊनविंशति वर्षीय क्रीडकाणां एशिया चषक स्पर्धायां एकदिवसीयान्त राष्ट्रियक्रिकेट स्पर्धायां पाकिस्तानं षष्टि धावनांकै पराजितम्